राज्यप्रशासनेन त्रिण्णवति सहस्र कोटि रूप्यकात्मिकानि प्रमाणितानि सन्धिपत्राणि

प्रधानमंत्री प्रधानमन्त्री नरेन्द्रमोदी प्रतिपादितवान् यत् भारतदेशस्य अर्थव्यवस्था अद्यापि दृढा संवृतास्ति आधारभूता संरचना चापि शिथिला नैव अद्य हिमाचल प्रदेशे धर्मशालायां दिवसदवयात्मकस्य वैश्विक निवेशक सम्मेलनस्य राइजिंग हिमाचल इत्यस्य उदघाटनक्रमे श्रीमोदिना प्रोक्तं यत् देशस्य विकासः नूतन विचारप्रस्सरम तीव्रगत्या भवति तेन भणितं यत इतः प्राक एतादृशानां सम्मेलनानाम् आयोजनं देशस्य केष्चित् भागेष् एव भवति स्म परं स्थितिः सम्प्रति परिवर्तिता देशे विगतेभ्यः वर्षेभ्यः राज्य प्रशासनानि निवेशकेभ्यः भद्रतम स्विधाः प्रददति तेन उक्तं यत् हयः सञ्जातोपवेशने देशस्य मध्यम वर्गाय बृहतराःनिर्णयाः विहिताः हिमाचलप्रदेशस्य विकासमुददिश्य निवेशार्थं देशस्य प्रतिनिधिभ्यः प्रम्खेभ्यश्च प्रस्तावाः योजनाश्च प्रम्खतया चर्चिताः अवसरेऽस्मिन् हिमाचल प्रदेशे निवेश सम्भावनानां विषये एकं लघ् चलचित्रमपि प्रदर्शितम् महा चक्रवातः अरबसागरस्य पूर्वोत्तर केन्द्रोद्भूतः महा इत्याख्यः प्रचण्डः चक्रवातः पूर्वदिग्भागं सम्प्राप्य मन्दगतौ परावर्तितः स्थानीय ऋत् पूर्वान्मानस्य विभागान्सारि दक्षिणस्यां दिशि ग्जराततटं निकषा अरब सागरस्य पूर्वोतर भागे चक्रवातोऽयं मन्दगतिं प्राप्स्यति एतस्मात् कारणात् गुजरातस्य दक्षिणभागे मन्द मध्यम वृष्टिपातः सम्भाव्यते गुरुनानक जन्मशताब्दी केन्द्रीय मानव संसाधन विकास मन्त्रिणा रमेश पोखरियाल निशंकेन खादय प्रसंस्करण मन्त्रिणा हरसमिरत कौर बादलेनाद्य नवदिल्ल्यां ग्रु नानक देव सम्बद्धानि त्रीणि पुस्तकानि विमोचितानि पुस्तकानां विमोचनं गुरुनानक देवस्य सार्ध पञ्च शत तर्मी जन्मशताब्दीम्पलक्ष्य जातम् पञ्जाबी भाषायां विरचितानि ग्रुनानक बानी नानक बानी साखियां ग्रुनानक देव इति त्रीणि प्स्तकानि नेशनल बुक ट्रस्ट इत्यनेन प्रकाशनेन प्रकाशितानि

अद्य आरोपी अयं दशोतर द्विसहस्रतमे वर्षे कोयम्बटूरे बालिकया समं सामूहिक द्ष्कर्म प्रकरणे संलिप्तः अवर्तत

तत्र लाहौल स्पीति किन्नौर कुल्लू जनपदेषु च हिमपातः सूचितः

ऋतुविभागेन तत्र उच्च शिखरेषु अद्य श्वः च हिमपातः अनुमानितः

एतस्मात् राष्ट्रिय राजमार्गः तत्र अवरुद्धः उपराष्ट्रपतिः उपराष्ट्रपतिना एम वैंकैया नायड्ना सबलं प्रतिपादितं यत् देशे स्वास्थ्य सम्बद्ध सेवानाम् उच्च प्राथमिकता स्तरे महत्यावश्यकता वर्तते अद्य नवदिल्ल्यां दशमे आकस्मिक औषध सम्बद्ध एशिया सम्मेलने श्री नायड्ना भणितं यत् रेलयात्रिभ्यः न्तन कार्यक्रमाणां प्रथमोपचारस्य च आवश्यकता विद्यते एतद्विषये भारतीय जनता पार्टीति प्रशासनमपि श्रीनायड्ना प्रशंसितम्

इदं हि गृहराज्यमन्त्रिणा नित्यानन्द रॉयेन प्रतिपादितम्